उभे अपि सदने अनिश्चितकालायस्थगिते संसद राष्ट्रिय अवसंरचना वित्तविकासकोषस्य स्थापनायै विधेयकं पारितम जी पी एसप्रविधियुतायां राजमार्गकरसंग्रहण प्रणाल्यां दिल्लीत मुम्बय्यी यावत् ई हाइवे इत्यत्र सर्वकारीय प्रायोजना देशस्य षट् राज्येष् कोविड संक्रमण प्रकरणेष् अप्रत्याशिता वृद्धि दैनिक प्रकरणानां अशीतिप्रतिशतं प्रकरणानि राज्येष् एतेष् एव देशे साम्प्रतं यावत् एकत्रिंशल्लक्षोत्तर पंचकोटि मितानि कोरोना सूच्यौधानि प्रदत्तानि असम पश्चिम बंगालयो विधानसभा निर्वाचनस्य प्रथमचरणीय मतदानाय निर्वाचनप्रचार अदय सायंकाले समाप्त प्रधानमंत्रीनरेन्द्रमोदी द्विदिवसीय यात्रायांश्वः बाङ्ग्लादेशंगमिष्यति

बजट संसदा वित्तसंकल्पनापत्रकाधिवेशनं अनिश्चितकालाय स्थगितं जातम् उभयो सदनयो अधिवेशनस्य अस्य स्थगनेनैव सह सत्रकाधिवेशनम् इदं समयात्पूर्वमेव समाप्तं जातम्

राज्यसभाया सभापतिना एम वेंकेया नायड़ना भणितं यत् वित्तसंकल्पनापत्रकाधिवेशनान्तर्गतं समेत्य एकोनविंशति विधेयकानि पारितानि तेन संसूचितं यत् अधिवेशनावधौ उत्पादकता प्रतिशतं नवतिमितं जातम् कोविड महामार्या दिइनिर्देशप्रस्सरं सदनस्य कार्यान्वयनाय सभापतिना सर्वे सदन सदस्या वर्धापिता एतत्पूर्व लोकसभाया कार्यवाहकाधिकारिणा भर्तृहरि महताबेन प्रतिपादितं यत् अधिवेशनान्तर्गतं लोकसभायां अष्टादश विधेयकानि पारितानि सप्तदश विधेयकानि च संप्रस्तुतानि अदय च सर्वै लोकसभा सदस्यै लोकसभाध्यक्षाय ओमबिरलायै कोविडत शीघ्रं स्वास्थ्यलाभाय स्वाशिषकामना प्रकटिता

अदय च असम पश्चिमबंगालयो तृतीयचरणीय मतदानाय एवंच केरल तमिलनाइराज्ययोः केन्द्रशासित प्दच्चेर्या च मतदानाय निर्वाचनप्रचारः द्रतगतिं प्राप्नोति अवधेयास्पदं यत् असमप्रदेशे प्रथमचरणीय निर्वाचनक्रमे मासस्यास्य सप्तविंशति तमे दिनांके सप्तचत्वारिंशत् निर्वाचनक्षेत्रेष् मतदानं सम्पन्नं भविष्यति

पश्चिमबंगाले प्रथमचरणीयनिर्वाचने त्रिंशत्आसनेष् मतदानं समन्ष्ठास्यते उभयो राज्ययो दवितीय चरणाय मतदानं एप्रिलमासस्य प्रथमे दिनांके भविष्यति

प्रहलादः जोशी केन्द्रीयः संसदविषयकः मन्त्री प्रहलादः जोशी अवदत् यत् भिन्नेष् राज्येष् निर्वाचनकारणात् सांसदानाम् अन्रोधप्रस्सरं वित्तसङ्कल्पनापत्रसत्रस्य अवधिः न्यूनीकृतः वार्ताहरैः सह संवादे श्रीमान् जोशी हर्ष प्रकटयन् अवदत् यत् उभयोः सदनयोः कार्यजातं सम्यक्तया परिपूर्णतां गतम् तेन विपक्षिदलानाम् अपि धन्यावादः प्रकटितः येषां सहयोगेन संसदः कार्यजातं सम्यक्तया सम्पन्नम्